केन्द्रीयान्वेषणविभागेन संजयभण्डारिणं विरुद्धय एकाप्राथमिकी पञ्जीकारिता भारतदेशेनोक्तं यत् पाकिस्तानदेश आतंकवादनिरसनाय कार्य ं कुर्यात् एक आतंकवादी जम्मुकश्मीरस्य बारामुलाजनपदे सुरक्षाभटै मारित

प्रधानमंत्री प्रधानमंत्री श्रीनरेन्द्रमोदी अद्य सायं देशस्य मुख्यतमै अर्थशात्रिभि साकं देशस्य अर्थनीतिम अभ्यन्नेतं विशिष्टं विचारविमर्शं करोति उपवशनेऽस्मिन् प्रमुखतया आर्थिकवृद्धयै आजीविकासुजनाय च व्यापकरीत्या चर्चां विधास्यति उपवेशनस्य आयोजनं दिल्ल्या नीत्यायोगसंस्थया विधीयते उपवेशनेऽत्र विभिन्नक्षेत्रेष् विषयविशेषज्ञा उद्योगपतयश्च भागं भजन्ति विदेशमन्त्रालय भारतं पाकिस्तानदेशाद अपेक्षां करोति यत् स वैश्विक संगठनस्य एफटीएफ व्विस्य कार्ययोजनां पूर्णतोदृशा पालनाय अस्य वर्षस्य सितम्बरमासं यावत सर्वे आवश्यका प्रभावकारिणश्च पदक्षेपा आचरिष्यन्ते विदेशमन्त्रालयस्य प्रवक्त्रा रवीशकृमारेणोक्तं यत् पाकिस्तानदेश आतंकवाद आतंकवादिनां च कृते सुलभायितवित्तीयसहायताम् अवरोधनाय विश्वसनीया सत्यापनीया अपरिवर्तनीया चिरस्थायिनश्च उपाया विधेया

बोनियारक्षेत्रे भुजथालान द्वित्र अरण्ये सुरक्षाबलानां सामान्यनिरीक्षणावसरे अयं संघर्ष द्रापन्न सर्वकारीयसूत्रै ज्ञापितं यत् अतिरिक्तसुरक्षाबलानि घटनास्थलं प्रति प्रेषितानि अरण्येऽस्मिन् सर्वतोदृशा अन्वेषणाभियानञ्च क्रियतेऽध्ना सीबीआई विमानम् केन्द्रीयान्वेषणविभागेन नवोत्तरद्विशततमेऽब्दे पञ्चसप्तति पा जिट्स बेसिक ट्रेनर मि विमानाना क्रयणस्य कथितभ्रष्टाचारसन्दर्भे भारतीयवायुसेनाया रक्षामन्त्रालयस्य अज्ञाताधिकारिण विवादास्पदास्त्रव्यापारिणश्च सञ्जय भण्डारिणं विरुदध्य एका प्राथमिकी पञ्जीकारिता जावड़ेकर केन्द्रियसूचनाप्रसारणमन्त्रिणा प्रकाशजावडेकरेण उक्तं यत् द्रदर्शनस्य सर्वाधिका श्लाघा तस्य विश्वसनीयता वर्तते अथ च द्रदर्शनं सर्वप्रकारेण बृहत्तमं डी टी एच ऑपरेटर क्रि सब्चालकं अस्ति येन माध्यमेन सम्पूषेऽपि देशेऽस्मिन् लक्षश जना कार्यक्रमै लाभान्विताभवन्ति अद्य श्रीनगरे निशुल्कं द्रादर्शनं डिश सेट टॉप बॉक्स क्रि प्रदानाय आयोजिते एकस्मिन् समारोहे श्री प्रकाशजावडेकरेणोक्तं यत् सम्पूणेऽपि भारतवर्षे प्रत्येकस्यां भाषायां सप्रशततोऽपि अधिका दृश्यवाहिन्य सक्रियत्वेन कार्याणि आचरन्ति तेनोदीरितं यद अस्मिन् समये नवकोटिमिता दूरदर्शनवाहिन्य डीटीएच क्रि माध्यनेन सक्रिया सन्ति

द्वानीं यावत् भारतस्य चतुष्क्रीडकहानि दृश्यते ति वार्ताः